प्रधानमन्त्री एम्स राजकोट प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य दृश्य श्रव्य परान्तर्जालीय माध्यमेन ग्जरातस्य राजकोटनगरे अखिल भारतीय आय्र्विज्ञान संस्थानस्य आधारशिला स्थापिता अवसरेऽस्मिन् प्रधानमन्त्रिणा निगदितं यत् निवर्तनमानोऽयं ख्रिष्टाब्द स्वास्थ्यसंकटै परिपूर्णमासीत् एकविंशत्यधिकद्विसहस्रतमश्च वर्ष समाधानस्य भविष्यति तेनोक्तम् अनेन सर्वकारेण स्वास्थ्य क्षेत्रे समग्रदृष्ट्या सह कार्यं कृतम् निवारक उपायै सह अत्याध्निक सुविधास् अपि कार्यारब्धा तेन अग्रे उक्तं यत् राष्ट्र पूर्णसन्नद्वतया सूच्यौषधिदानाय तत्पर अस्ति श्रीमोदिना भणितं यत् आयुष्मानभारत योजनया निर्धनानां त्रिंशत्सहस्रकोटिरुप्यकाणि सुरक्षितानि अनया योजनया न्यूनधनत्वात् निदानस्य अस्गमताया समस्यया मोचिता निर्गतदशकद्वयो सुदृढ़ चिकित्सीय संरचनाया वरिवर्धनाय मोदिना ग्जरातप्रदेशं प्रशंसितम् अग्रे चोक्तम् तेन यत् आय्र्विज्ञानसंस्थानमिद स्वास्थ्यसम्पर्कीय श्रंखलां द्रढ़ी करिष्यति विशिष्टावसरेऽस्मिन् प्रदेशस्य म्ख्यमन्त्रिणा विजयरुपाणीवर्येण प्रोक्तं यत् राज्यस्य सुदूरस्थेषु क्षेत्रेष्वपि स्वास्थ्यसौविध्यं प्रापणाय संस्थेयं महतीं भूमिकां निर्वक्ष्यति ग्जरातप्रदेशस्य राज्यपालेन आचार्य देवव्रतेन साकं स्वास्थ्यमंत्री डॉ हर्षवर्धन केन्द्रिय स्वास्थ्य राज्यमंत्री अश्विनीक्मारचौबेवर्यश्च अवसरेऽस्मिन् उपस्थिता आसन्

केन्द्रिय सर्वकारेण राज्यानि केन्द्रप्रशासितप्रदेशाश्च सूच्यौषधि दानाय सुनिश्चितां व्यवस्थां कर्तुं समादिष्टा केन्द्रिय स्वास्थ्य सचिव राजेशभूषण उक्तवान् यत् सूच्यौषधे अभ्यासाय राज्यानां प्रमुख सचिवै अन्यै जनैश्व साकं एकं उच्चस्तरीयोपवेशनं विहितम् राज्यानां राजधानीष् न्यूनतमं त्रिष् स्थलेष् अस्या सूच्यौषधिदानस्य अभ्यासो भविष्यति इति महाराष्ट्र केरलयो राजधानीभ्यां सह अन्येष् निर्दिष्टेष् नगरेष् अपि सूच्यौषधे दानाभ्यास भविष्यति कोविड अद्यतन देशे विगते चत्र्विंशति होरावधौ कोविड नवदश संक्रमणस्य एकविंशत्यधिक अष्ट शतोत्तर एकविंशतिसहस्रसंख्यकानवीनानि प्रकरणानि प्रकाशे आयान्ति अद्यावधि देशे संक्रमितानां समग्र संख्या चत्स्सप्ति अधिक षड् शतोत्तर षड्षष्टि सहस्राधिकैक कोटि जाता स्वास्थ्यमन्त्रालयेन निगदितम् यत् विगते अहोरात्रे नवनवत्यधिकद्विशतसंख्यका जना कालकवलिता अभवन् सम्प्रति देशे सक्रियसंक्रमितानां संख्या षड्पञ्चाशदधिकषड् शतोत्तर सप्तपञ्चाशत् सहस्रं जायते अपि च नवत्रिंशदधिकैकशतोत्तर षड्विंशतिसहस्रं जना स्वस्थीभूय गृहं प्रत्यागता एवञ्च साम्प्रतं देशे स्वस्थीभूतानां मिति षण्णवति दशमलव श्न्य चत् परिमिता सञ्जाता भवन्त भवत्यश्च संस्कृतवार्ताया संस्करणमिदं इदानीम् आकाशवाणीत श्रण्वन्ति

कृषि वार्ता अग्रिमा कृषिसंघै सह संभाविता वार्ता आगामी मासस्य चत्थे दिनांके भविष्यति ह्यस्तनीया षड्तमा वार्ता सकारात्मकपरिस्थितौ आशास्पदं च अभवदिति कृषिमन्त्रिणा नरेन्द्रसिंह तोमरेण उक्तम् मन्त्रिणा च आन्दोलनरतान् संघान् आह्वयन् निगदितं यत् शीतस्य द्ष्प्रभावं द्रष्ट्वा वृद्धा बाला महिलाश्च आन्दोलन स्थलात् प्रत्यावर्तितव्या इति निशंक सीबीएसई शिक्षामन्त्री रमेशपोखरियाल निशंक अद्य सायंकाले षड् वादने दशमी द्वादशीकक्षयो सीबीएसई बोर्ड परीक्षाया तिथे घोषणां करिष्यति एतस्मात् प्राक् शिक्षकै सार्धं आभासीय माध्यमेन संजातायां वार्तायां तेन प्रतिपादितं यत् केन्द्रिय माध्यमिक शिक्षा बोर्ड विंशति एकविंशति सत्रस्य परीक्षायै आवश्यकीं सन्नद्धतां साधयिष्यति असौ प्रोक्तवान् यत् छात्राणां शिक्षकाणां अभिभावकानाञ्च प्रस्तावानुसार परीक्षाया व्यवस्था सम्यक्तया क्रियमाणा अस्ति दहित्या रात्रावरोध सर्वकारेण ख्रिष्टीय नव वर्ष समारोहेषु जनसम्मर्द वारणाय अ अद्य रात्रौ एकादशवादनत श्व रात्रिं यावत् गत्यावरोध सुनिश्चित श्व प्रात षड्वादानन्तरं रात्रौ एकादशवादनं यावत् व्यवस्था पूर्ववती स्थास्यति अवरोधावसरे जनानां वस्तुवाहनानां वा आवागमनं निर्वाधं भविष्यति ब्रिटेनदेशे संजातस्य नवप्रकारस्य संक्रमणस्य राजधान्यां प्रसारावरोधित् निर्णयोऽयं गृहीत देहल्या मुख्यसचिवेन नागर आपदा प्रबंधनप्राधिकरणस्य अध्यक्षेन विजयदेवेन स्व आदेशे निर्दिष्ट यत् देहल्या सर्वेऽपि मण्डलाधीशा आरक्षी उपायुक्ता सम्बन्धिनश्च अन्येऽपि अधिकारिण अस्य आदेशस्य सुदृढरीत्या परिपालनं कुर्यु

राजमार्गमन्त्रालयेन निर्दिष्टम् येन हि जनानां समयहानि इंधनहानिश्च वारयित् शक्यते

अस्य प्रदेशस्य आरक्षिण प्रवक्त्रा प्रोक्त यत् गत ब्धवासरे पञ्जाबमन्त्रिमण्डलेन परिवर्तनै प्नर्गठनै साकं इद विधेयकं पारितम्